एतेष् एक चत्वारिंशत् गृहाणां निर्माण कार्यं सम्पन्नम्

समितेः इदंद्विपञ्चाशततमम् उपवेशनम् अवर्तत अत्र मन्द्रणायां चत्दश राज्यानां केन्द्रप्रशासितप्रदेशानां च अधिकारिणः सहभागितां आवहन् अत्रावसरे मन्त्रालये सचिवः द्र्गाशंकरमिश्रः अधिकारिणः विनिर्दिष्टाः यत् ते एतस्याः योजनायाः क्रियान्वयनं तीव्रगत्या क्र्वन्त्

स्वास्थ्यमन्त्रालयेन उक्तं यत् विगते चतुर्विशतिहोरावधौ आहत्य ऊनपंचाशदुत्तर षट्शताधिक एकत्रिंशत् सहस्रोत्तर एकलक्षजनेभ्यः सूच्यौषधमिदं दत्तम् सर्वाधिक सूच्यौषधप्रदानेष् राज्येष् कर्णाटकराज्यमस्ति शीर्षवर्ति भारते कोरोना भारते कोरोनात स्वस्थीभूतानां प्रतिशतता प्रवर्ध्य पण्णवति दशमलव सप्त पञ्च परिमिता समंकिता विगते अहोरात्रे नवदश सहस्रं संक्रमण पीड़िता चिकित्सालयेभ्यो विम्क्ता स्वास्थ्य मन्त्रालयान्सारं देशे स्वस्थीभूतानां क्लसंख्या आहत्य पञ्चषष्टि सहस्राधिक द्वि लक्षोत्तर एककोटि मिता संवृत्ता वर्तमाने संक्रमितानां सक्रिया संख्यास्ति द्वि नवति सहस्रोत्तर एकलक्ष परिमिता तत्रैव विगतास् चत्र्विंशति होरास् प्राय द्वि शताधिक पञ्चदश सहस्रं महामार्या नूतनानि प्रकरणानि प्ष्टिंगतानि इत्थम् अद्यावधि संक्रमितानां क्ल संख्या भ्रयोपि षट्लक्षोत्तर एककोटि मिता संजाता मृत्य्मिति अपचीय एक दशमलव चत् चत् मिता वर्तते

भारतद्वारा हय भूटानदेशं मालदीवं च प्रति सूच्यौषध मैत्री उपक्रमान्तर्गतं सूच्यौषधानि सम्प्रेषितानि विदेशमन्त्री डॉ एस जयशंकर प्रावोचत् यत् सूच्यौषधमैत्री प्रारब्धा अथ सूच्यौषधानि भूटानं प्राप्तानि सन्ति डॉ जयशंकरेण उपक्रमोयम् भारतस्य प्रतिवेशि प्राथम्य नीते अन्यतमम् उदाहरणम् इत्य्दीरितम् भूटानस्य विदेशमन्त्री तान्दी दोर्जे वर्य सूच्यौषधप्राप्तेरनतरं भारतं प्रति आभारं प्रकटीकृतवान्

स्वसन्देशे राष्ट्रपति रामनाथकोविन्द अवोचद् यत् एतानि राज्यानि प्राकृतिक सौन्दर्येण समृद्वेतिहासै उन्नतसंस्कृतिभि च अलंकृतानि सन्ति उपराष्ट्रपति एम वेंकैया नायड् प्रोक्तवान् यत् उत्तर पूर्व राज्यानि भारते म्ख्यं स्थानं त् रक्षन्ति एव देशं स्वस्थ जीवनचर्या चापि शिक्षयन्ति

प्रधानमन्त्री प्रधानमन्त्री नरेन्द्र मोदी श्वः असमस्थितस्य तेजपुर विश्वविदयालयस्य अष्टादशम् दीक्षान्तसमारोहं सम्बोधयिष्यति दृश्य श्रव्य संवादप्रणालिकया कार्यक्रमोयं श्वः सार्ध दशवादने आयोजयिष्यते तत्र कार्यक्रमे गतवर्ष समायोजितायां परीक्षायां उत्तीर्णेभ्य अष्टादशाधिक दवि शतोत्तर एक सहस्र संख्याकेभ्य परीक्षार्थिभ्य प्रमाण पत्राणि प्रदास्यन्ते अत्र विभिन्न विषयेष् प्रथमं स्थानम् अर्जितेभ्य अष्ट चत्वारिंशत् छात्रेभ्य स्वर्ण पदकानि अपि दास्यन्ते लद्दाख लद्दाखे केन्द्रीय खेल य्वा मन्त्री किरेनरिजिज् प्रथमं तावत् खेलो इंडिया ज़ान्स्कार शीतर्त् क्रीडा महोत्सव समारभत अयं खेलोत्सव कारगिल जनपदस्य जान्स्कार स्थिते पदम स्थले समायोज्यते इमम् उत्सवम् लद्दाख इति केन्द्रशासित प्रदेशस्य प्रबन्धन समिति समायोजयति महोत्सवायोजनस्य उद्देश्यं ज़ान्स्कार स्थलं शीतर्तौ पर्यटकेभ्य आकर्षक भ्रमणस्थलत्वेन उपस्थापनं विदयते

यत्र नैके विषया मन्त्रिता अत्रोपवेशने कृषक संघटनानां चत्वारिंशत् प्रतिनिधिय सहभागं कृतवन्त केन्द्रपक्षत कृषिमन्त्री नरेन्द्रसिंह तोमर वाणिज्य मंत्री पीयूष गोयल वाणिज्य राज्य मंत्री सोमप्रकाशश्च उपस्थिता आसन् प्रशासनेन संघटनस्य समक्षं कृषि विधेयकानि सार्धैक वर्षाय नैव प्रवर्तन सम्बद्धः प्रस्ताव प्रस्त्र्तः मन्त्रणानन्तरं कृषिमंत्री न्यगादीत् यत् प्रशासनं कृषकाणां सकल समस्या समाधात् वर्तते प्रतिबद्वम् अग्रिमा वार्ता जनवरी द्वाविंश्या समायोजयिष्यते निर्वाचन आयोगदलम् भारतीय निर्वाचन आयोगस्य दलं पश्चिमबंगालस्य त्रिदिवसात्मक यात्रायां वर्तते दलमिदं विधानसभानिर्वाचनानां सज्जा प्नर्वीक्षित्ं गतमस्ति म्ख्य निर्वाचन आय्क्तः स्नील अरोडा अपि च निर्वाचनाय्क्तौ स्शील चन्द्र राजीवक्मारौ प्नर्वीक्षण सम्मेलनानि अद्य आवहन्ति एतै विभागीय आधिकारिभि सह अपि मेलनं विहितम्

भवनस्य तृतीये तले द्र्घटना इयम् घटिता अग्निकाण्डे सिरमसंस्थान दवारा निर्मितानां सूच्यौषधानां न कथमपि हानि अभवत्